अखिलभारतीय आय्र्विज्ञान संस्थानस्य सफदरजंग चिकित्सालयस्य च आवासीय चिकित्सकाः कार्यविरामान्दोलनं समाप्य स्वकार्य पुनरारब्धवन्तः

जम्मूकश्मीर प्रतिबन्धा जम्मू कश्मीर चत्थत्वारिशद्तर शत तम्याः सांवैधानिक धारायाः अन्तर्गतं प्रशासेन श्रीनगरे अन्येष् च केषुचिज्जनपदेष् गत निशीथात् प्रतिबन्धाः समारोपिताः प्रत्यप्र निर्देशाऽनुसारि तत्र सम्प्रति लोकाना गमनागमनानि निषिद्धानि सकलानि शैक्षिक प्रतिष्ठानानि च पिहितानि स्थास्यन्ति आधिकारिक विज्ञप्ने व्याहृतं यद् राज्यस्य जम्मू किश्तवाड़ रियासी डोडा उधमप्र जनपद स्थाः सर्वेऽपि विद्यालय महाविद्यालयाः अद्य पिहिताः भविष्यन्ति किश्तवाड़ राजौरी जनपदयोः रामबनस्य बानिहाल क्षेत्रे च गत निशीथादेव जनानां सब्चारावरोधः पूर्णतया प्रवर्तितः कश्मीरोपत्यकायां चलद्रभाषः आन्तर्जालिकी सेवा च सद्यः स्थगितौ ततः पूर्वं गतसायं नवदेहल्यां केन्द्रीय गृहमन्त्री अमित शाहः वरिष्ठः स्रक्षाऽधिकारिभिः मन्त्रणामन्वतिष्ठत् एवमाकल्यते यन्मन्त्रणायां जम्मू कश्मीर अन्वर्तमानां स्थितिमाधृत्य तैः सविस्तरं विमर्शो व्यधायि होरा व्यापिनि अमुष्मिन् मन्त्रणोपवेशने राष्ट्रिय सुरक्षा परामर्श दः अजित डोभालः केन्द्रीय गृह सचिवः राजीव गौबा नैके इतरे वरिष्ठाः अधिकारिणश्चोपस्थिताः अवर्तन्त यासीनमलिक तिहाड़ कारा गृहस्य महा निदेशकः सन्दीप गोयलः अब्रवीत् यत् कश्मीर पृथक्तावादि नेत्ः यासीन मलिकस्य स्वास्थ्य स्थितिः साम्प्रतं सर्वतो भद्राऽस्ति

तेनोदीरितं यद् राष्ट्र राष्ट्रिय हितं च अस्माकं कृते सर्वाधिकं प्रामुख्यमावहति सः गतदिवसे स्वीय सांसदानां द्विदिवसीयं प्रशिक्षण कार्यक्रमं समुद्वोधयति स्म

ततः पूर्व केन्द्रीय स्वास्थ्य मन्त्रिणा श्रीहर्ष वर्धनेन राष्ट्रिय चिकित्सायोग विधेयकमधिकृत्य तेषां चिन्ता विषये प्रशासन द्वारा पुनर्विचारणायाः आश्वासनं प्रदत्तम् इमे चिकित्सकाः तस्मिन् विधेयके कतिचन संशोधनानि अभियाचमानाः आसन्